न्यूयॉके संयुक्तराष्ट्रमहासभाया चत्सप्ततितमं अधिवेशनं सम्बोधयता श्रीमोदिना प्रोक्तं आतंकवाद मानवतायै वृहत्तमं समाह्वानं विद्यते आतंकवाद विरुध्य ऐक्यम् आवश्यकं वर्तते प्रधानमन्त्री नरेन्द्रमोदी बांग्लादेशस्य भूटानस्य च प्रधानमन्त्रिभ्यां सह द्विपक्षीयं संभाषणं अकरोत् भारतीय बैडमिण्टनक्रीडक परूपल्ली कश्यप कोरिया ओपन बैडमिण्टन प्रतिस्पर्धायां पुरूषैकलवर्गस्य उपान्त्यचक्रे प्रविष्ट प्रधानमंत्री प्रधानमिन्त्रणा नरेन्द्रमोदिना जगत नेतार मानवतायै आतंकवादं विरुध्य अध्यार्थिता न्यूयॉके संयुक्तराष्ट्रमहासभाया चत्ःसप्ततितमं अधिवेशनं सम्बोधयता श्रीमोदिना प्रोक्तं आतंकवाद मानवतायै वृहत्तमं समाह्वानं विद्यते आतंकवादं विरुध्य ऐक्यम् आवश्यकं वर्तते अपि चोक्तं यत् आतंकवादविषये विभक्तं विश्वं संयुक्तराष्ट्रस्य स्थापनाया मुख्यकारणान् क्षतिं प्रददाति अस्य स्थापना सर्वविधया आतंकोन्मूलनाय अभवत् श्रीमोदिना निगदितं यत् जगति अस्मिन् समये शान्ते सन्द्रावस्य च महती आवश्यकता वर्तते वित्तमंत्री वित्तमंत्रिणा निर्मला सीतारमेण सर्वेभ्य मन्त्रालयेभ्य आगामि चत्ः त्रैमासिक्यै पूंजीगत व्ययस्य विवरणम् अभियाचितम् ये प्रशासनम् आर्थिकवृद्वौ ध्यानकेन्द्रितं कर्तम् शक्नुयात् प्रम्खमन्त्रालयानां सचिवैः आर्थिक परामशंकैश्च साकम् उपवेशने निर्णयोऽयं स्वीकृत उपवेशनस्य अनन्तरं वार्ताहर सम्मेलने वित्तमंत्री प्रोक्तवती यत् अस्योदेश्यं सेवाप्रदातृणां शेषधनस्य सुनिश्चियं वर्तते तयोक्तं यत् प्राशासनिक व्यय यथावस्थमेव प्रचलति सीसीआई सीसीआई जि भारतीय प्रतिस्पर्धा आयोजन सऊदी अरबदेशस्य अरामको जि तैल समवायस्य कृते सऊदी बेसिक डिस्ट्रीज कॉरपोरेशन विस्य प्रतिशतं सप्ततिमितम् अंशधनस्य क्रयणानुमति प्रदल्ता

सि स्रीआईसी सि समवाय मुख्यरूपेण भारते कृषिपोषकतत्वोत्पादानाम् आपूर्ति विदधाति

योजनेऽयं ग्रामीण स्वच्छतायां मुक्तशौचग्रामेष् च स्वच्छताया नूतनपरिदृश्यं निर्मास्यति

जोधप्र बालेसर राष्ट्रीय राजमार्गे दर्घटना तदा अभवत् यदा किस्य लघ् बसयानस्य बोलेरोकारयानेन सह संघट्टन अभवत् बैडमिण्टन भारतीय बैडमिण्टनक्रीडक परूपल्ली कश्यप कोरिया ओपन बैडमिण्टन प्रतिस्पर्धायां पुरूषैकलवर्गस्य उपान्त्यचक्रे प्रविष्ट